प्रधानमन्त्री बांग्लादेशस्य प्रधानमन्त्री शेख हसीना चतर्दिवसीय यात्रायाम गुरुवासरे दिल्लीं सम्प्राप्तवती

विदेशमन्त्री एस जयशंकर अपि शेख हसीनया सह मेलनं अकरोत् अमित शाह केन्द्रीयो गृहमन्त्री अमित शाह ह्य नवदिल्ल्यां सीमसुरक्षाया वर्तमानां स्थितिं भद्रीकर्त् उपायानां समीक्षायै आयोजितस्य उच्चस्तरीयोपवेशनस्य अध्यक्षताम् अकरोत् गृहमन्त्री महानिदेशकान् निर्दिष्टवान यत् ते सीम सुरक्षां प्रभावयतां सर्वेषां विवादानां अभिज्ञानं कुर्यु अस्मिन् सम्बन्धे मन्त्रालयेभ्य विस्तृतां योजनां यच्छेयु कश्मीर कश्मीरस्य विषये पाकिस्तानेन सह स्थितं तुर्की देशं मलेशिया देशं च भारतं उक्तवान पाकिस्तानस्य पक्षे कश्मीरस्य विषये मलेशियाया तुर्क्याध टीकानन्तरं भारतेन तेषां टीका खण्डित भारतस्य विदेश मन्त्रालयस्य प्रवक्ता रवीश कुमार न्यगदत् यत् तौ एतादृशी टीकां सुविचार्य कथयेताम् कश्मीरराज्यस्य विषय भारतस्य आन्तरिक विषयोऽस्ति

बिहाराय चतु्शत कोटि रुप्यकाणां कर्नाटकाय द्वादश शतकोटि राशे स्वीकृति प्रदत्ता

अनेन सहैव स्पर्धामालिका भारतेन विजिता